एतदन्तराले कोरोनास्वस्थतामिति चत्र्णवति दशमलव त्रि शून्यं वर्तते असम पश्चिमबंगालराज्ययोद्वितीयचरणस्य विधानसभानिर्वाचनस्य प्रचाराभियानं द्रुतगत्या प्रवर्तते

अदय समग्रे अपि देशे विविधवर्णमयं होलिकोत्सवं हर्षोल्लासेन परिपाल्यते मिम्रदेशस्य स्वेज इत्यस्यां क्ल्यायाम् अवरूद्धस्य भारवाहक पोतस्य निवर्तने आंशिकी सफलता प्राप्ता

भवन्तोऽपिअस्माभि सहस्रक्षाया उपायत्रयस्यसङ्कल्पंस्वीक्वन्त् म्खावरकंसन्धारयन्त् सामाजिकदूरतांपरिपालयन्तु पाणिपादंचयथासमयंप्रक्षालयन्त्

इत्थं अदयतनं कोरोणास्वस्थतामिति चतुर्णवति दशमलव त्रि शृन्यं वर्तते स्वास्थ्यमन्त्रालयानुसारि विगतचत्र्विशति होरास् अष्टषष्टिसहस्राधिकानि अभिवनकोरोनाप्रकरणानि समक्षमायातानि तत्रैव द्वात्रिशत्सहस्राधिका जना स्वास्थ्यलाभं प्राप्य गृहं प्रत्यागता देशस्य महाराष्ट्र कर्णाटक पंजाब मध्यप्रदेश ग्जरात केरल तमिलनाड् छत्तीसगढ प्रभृतिस् अष्ट राज्येष् कोरोनामहामार्या संक्रमणप्रकरणानि प्रतिदिनं वर्धमानानि सन्ति क्लसंक्रमितजनेष् चत्रशीति दशमलव पंचप्रतिशतं एतेष् एव राज्येष् सन्ति महाराष्ट्रे हय सर्वाधिकानि चत्वार्रिशत्सहस्राधिकानि कोरोनासंक्रमणस्य नूतनप्रकरणानि अंकितानि विधानसभा निर्वाचनम पश्चिम बंगाल राज्ये मतदानस्य दवितीयं चरणं अप्रैलमासस्य प्रथमे दिनांके भविष्यति इदं मतदानं त्रिंशत् विधानसभा निर्वाचनक्षेत्रेभ्य भविष्यति येष् नव आसनानि पूर्वी मेदिनीपुर जनपदात् सन्ति एष् विधानसभा क्षेत्रेष् नन्दीग्रामप्रम्खनिर्वाचनक्षेत्रम् अस्ति यतो हि पश्चिमबंगाल राज्यस्य वर्तमान मुख्यमन्त्री ममताबनर्जी इति अस्मात् क्षेत्रात् एव प्रत्याशिनी अस्ति भाजपादलस्य शुभेन्द् अधिकारी अत्र मुख्यमन्त्रिण ममता बनर्जी इत्यस्या सम्मुखं करिष्यति तत्रैव सीपीआईएम इत्यस्य दलस्य मीनाक्षी मुखर्जी अपि संयुक्त मोर्चा इत्यस्य संयुक्तदलस्य प्रत्याशिनीरूपेण सम्मुखीकरिष्यति षोडशाधिक दविसहस्राब्दस्य विधानसभाया निर्वाचने नन्दीग्राम इत्यस्मिन् क्षेत्रे तृणमूल कांग्रेसदलेन सप्तषष्टिप्रतिशतादपि अधिकानि मतानि प्राप्तानि ऊनविंशत्यधिकस्य दविसहस्राब्दस्य लोकसभाया सामान्ये निर्वाचने अस्मिन् क्षेत्रे त्रिषष्टि प्रतिशत्मतानि प्राप्तानि तर्रैव सद्य जातस्य लोकसभाया निर्वाचने भाजपादलस्य प्राप्त मतप्रतिशतं नवत्रिंशत् परिमितम् आसीत् इदानीं यावत् मतदानस्य द्वे दिने अवशिष्टे तावत् राज्ये प्रचारं तीव्रतां भजते असम राज्ये निर्वाचनस्य श्व अन्तिम दिवस वर्तते अस्मिन् चरणे पंचचत्वारिंशत् अधिकं त्रिशतं प्रत्याशिन विधानसभाया ऊनचत्वारिशते आसनेभ्यो निर्वाचने सन्ति मतदानं अप्रैलमासस्य प्रथमे दिनांके भविता राज्ये सर्वैरपि राजनीतिकदलेन प्रचारं तीव्रगत्या क्रियते

अस्य वर्षस्य षड्पंचाशत्दिवसीययात्रा जूनमासस्य अष्टाविंशतिदिनांकात् आरभ्य अगस्तमासस्य दवाविंशतिदिनांकं यावत् प्रचलिष्यति अस्यां यात्रायां त्रयोदशवर्षात् न्यूनानां पंचसप्तति वर्षाद् अधिकानाम् अपि च दोहद अवस्थाय्तानांमहिलानां यात्रार्थम् अन्मति नास्ति होबी अद्य समग्रे अपि देशे विविधवर्णमयं होलिकोत्सवं हर्षोल्लासेन परिपाल्यते इदं न केवलं जनान् मोदयति अपित् वृक्षवनस्पति पश्नामपि प्राणाधायकपर्वत्वेन विराजते एतदधि वसन्तऋतो आरम्भस्य असत्योपरि सत्यस्य विजयस्य बन्ध्त्वभावनायाश्च प्रतीकत्वेन अस्ति अवसरे अस्मिन् देशस्य राष्ट्रपतिना रामनाथकोविन्देन उपराष्ट्रपतिना वेंकैयानायइना प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना च जनेभ्य उत्सवम्पलक्ष्य श्भकामना प्रदत्ता जम्म कश्मीर आक्रमणम केन्द्रशासित जम्म् कश्मीरस्य बारामुला जनपदस्य सोपोरक्षेत्रे आतंकवादीनाम आक्रमणे दवौ जनौ वीरगतिं प्राप्तवन्तौ

व्रणितस्य चिकित्सालये उपचार प्रचलति दिवंगतेष् प्रथमं नागरपार्षद रियाज अहमद अपरश्च सैन्यभट शफ़ाकत अहमद वर्तते आक्रमण कर्तन् निगडनार्थ स्रक्षाबलै अन्वेषणाभियानं क्रियते अपरत्र उत्तरकश्मीरस्य क्पवाडा जनपदे स्रक्षाबलै ह्य सायंकाले विविधास्त्रै सह विप्लधनराशि प्राप्त भारवाहक पोत मिस्रदेशस्य स्वेज इत्यस्यां कृल्यायाम् अवरूदधस्य भारवाहक पोतस्य निवर्तने आंशिकी सफलता प्राप्ता स्वेज कल्या प्राधिकरणस्य अध्यक्ष ओसामा रब्बी प्रोक्तवान यत पोतम आकृष्य निवर्तनस्य उपायानन्तरं भारवाहकम् पोतम् एवर गिवनइत्यस्य इदानीं पून संचरणं भवति सः प्रोक्तवान् यत् निवर्तनस्य अनन्तरं पोतं बिटर ह्रदंप्रति नेष्यति अवधेयास्पादम् अस्ति यत् एवर गिवनइति भारवाहकं पोतं गत मंगलवारे स्वेज कल्याम् अवरूदध रक्षादलस्य प्रमुखेन प्रोक्तं यत् पोते विद्यमानानां चालकदलस्य सर्वे भारतीय सदस्या सुरक्षिता सन्ति

आजपा सची अदय भाजपा दलेन विधानसभाया उपनिर्वाचनार्थ प्रत्याशीनां एका सुची प्रकाशिता भाजपादलेन निर्वाचनार्थ महाराष्ट्रस्य पण्ढरप्रक्षेत्रात् समाधान महादेव इत्यस्य ग्जरात राज्यस्य मोर्वा हदाफ क्षेत्रात् निमिशाबेन मनहरसिंह सूथर इत्यस्य अपि च उत्तराखण्डस्य साल्टक्षेत्राय महेश जीना इत्यस्य नाम्न उदघोषणा कृता